आईसीएम्आर कोरोना आईसीएम्आर इति भारतीय चिकित्सा अन्सन्धान परिषद महानिदेशक डॉ बलराम भार्गव व्यज्ञापयत् कोरोना विषाणो प्रकोप साम्प्रतं साम्दायिक स्तरं नैव प्राप्त अपि च संक्रमणमिदं चरणद्वये एवावस्थितं वर्तते युगपदेव डॉ भार्गववर्येण सूचितं यत् आईसीएम्आर इति परिषद द्वि सप्तति प्रयोगशालासु अस्य संक्रमण परीक्षणस्य व्यवस्था प्रवर्तितास्ति एतदतिरिच्य प्राशानिक क्षेत्रस्य नव चत्वारिंशत् प्रयोगशाला अपि कर्मण्यस्मिन् निय्क्ता अम्नोक्तं देशे सप्ताहान्तं यावत् अतिरिक्तमपि प्रयोगशालाद्वयं व्यवस्थापयिष्यते यत्र प्रत्यहिन चत्र्दश शतं संक्रमण प्रतिदर्श संकलन परीक्षणं सम्भविष्यति

प्रधानमन्त्रिण कार्यालये राज्यमन्त्री डॉ जितन्द्रसिंह सबलं अकथयत यत जम्मूकश्मीरात् सप्तत्य धिक त्रिशत संख्याकस्यान्च्छेदस्य अपसाराणानन्तरं दवयो केन्द्रशासितप्रदेशयो नवीनोर्जा विश्वासश्च दृष्टिपथम् आयाते जम्मूकश्मीरं सम्प्रति नूतनैतिहासं विरचन पुरस्सरं अग्रेसरति

संजार्थं ब्रवीमि यत् मनीष तिवारिणा केन्द्रं समाक्षिप्तमासीत् यत् जम्मूकश्मीरवासिनो मन्यन्ते प्रशासनम् नैव जनोत्कर्ष प्रत्यृत केन्द्रशासितप्रदेशं समीहते